भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्प स्वीक्वन्त् मुखावरकं सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तू पाणिपादं च यथासमयं प्रक्षालयन्त्

असौ प्रत्यपादयत् यत् प्रशासनप्त दर्शकोविड संक्रमण अवसर अतिशय अल्पीयसि काल ऐव सुदृढ़ा स्वास्थ्य संरचना विरचितास्ति अम्ना प्रोक्तं यत् प्रशासनिक क्षम्रिक्य प्रशासनत्ति क्षम्रिक्य च समन्वित प्रयासत्वि कोरोना परीक्षणार्थं प्रयोगशालानां व्यापक संजालमस्ति निर्मितम् कोविड महामार्या कालदिशस्य प्रयासानां श्लाघां कुर्वता श्रीमोदिना भणितं यत् भारतस्य स्वास्थ्य निभालन प्रणाल्यां विश्वस्य विश्वासः नूतन स्तर सम्प्राप्तो वर्तत विधानमंत्री न्यगदत् यत् स्वास्थ्य क्षम्रस्थिय कृत वित्त सङ्कल्पना पत्रक अभूतपूर्व आवंटनमस्ति विहितम्

श्रीमोदी उदयित् यत् कोविड महामारी परिस्थितौ भविष्यत् काल प्रभावितया नियन्त्रणार्थं स्वास्थ्य संरचनाया सुदृढीकरणमस्ति आवश्यकम् प्रधानमंत्री प्रत्यपादयत् यत् दश्मिय सुदरस्थ क्षप्रिय स्वास्थ्य निभालन सौविध्य प्रदानार्थं प्रशासन स्वास्थ्य क्षम्रामिवध्य संवर्धित अस्ति प्रधानमंत्री न्यगादीत् यत् स्वास्थ्य क्षद्विस्ति सहस्र कोटि रूप्यकाणि व्ययीकरिष्यन्त ििि स्वास्थ्य सौविध्यक्ष् परिष्कारा भविष्यन्ति वृत्तविसरा चापि उत्पत्स्यन्त प्रधानमन्त्रिणा आत्मनिर्भर स्वास्थ्य योजनापि परिचर्चिता

प्रधानमन्त्रिणा छात्रा प्रोक्ता यत् अभियन्तृत्वाद् एकाद्भ्रता क्षमता भवत्सु भवति विकसिता या क्षमता पर्ट्रेन्ने इति पद्धतित समारभ्य पर्टेत्ते इति प्रतिष्ठा पर्यन्तं नयनस्य क्षमतांधारयति अर्थात् भवतां द्रदृष्टि भवति असौ प्रत्यपादयत् यत् भवन्तः सर्वे विज्ञान प्रविधि नवाचाराणां यस्मिन् मार्गे प्रचलन्तो वर्तन्तत्त्विस्मिन् मार्गे शीघ्रताया नास्ति किमपि स्थानम् भवद्भि यद्विचारितमस्ति यस्मिन् नवाचार आविष्कार कार्यरता सन्ति संभवत तस्मिन् कार्ये भवन्तः पूर्णसफला न स्यु किन्तु भवताम् असफलतापि सफलता एव मन्स्यत िितोहि भवन्तः ततश्चापि शिक्षणमवाप्स्यन्ति प्रधानमंत्री श्रीमोदीकार्यक्रम प्रीक्तवान् यत् आईआईटी खड़गप्र पक्षत यप्पञ्च सप्तति मिता नवाचाराविष्कारा विकसिता सन्ति तप्रिकत्रीकृत्य विश्वस्मिन्नपि विश्वप्रदर्शनीया

अस्माकं वार्ताहरो वर्णयति यत् भाजपा दल राजकोट अष्टासनधि भावनगर जामनगर चि सप्त सप्त आसनधि अहमदाबाद एक्रासन बेडोदरायां च आसनत्रय आधिपत्यमधिगतम्

ध्यानास्पदमास्ति यत् फरवरी एकविंश्यां सूरत अहमदाबाद बडौदरा जामनगर भावनगर राजकोट प्रभृतिष् क्षम्र्थ् नगर निगम निर्वाचनार्थं मतदानानि समन्ष्ठितानि अवर्तन्त

द्वि दिवसीय यात्रा वसर राष्ट्रपति अद्य गांधीनगर ग़्जरात क्व्वीय विश्वविद्यालयस्य तृतीय दीक्षांत समारोहभिगमपि अभजत

राष्ट्रपती रामनाथकोविंद श्व अहमादाबाद नगर मोट स्थितस्य नवनिर्मितस्य विश्वस्य बृहत्तम सरदार पटल क्रिक्ट स्टर्डियम क्रीडांगणस्य उद्घाटनं करिष्यति

राज्य स्वास्थ्य विभाग द्वारा प्रख्यापित विवरणान्सारण विगत चतुर्विंशति होरासु कोरोना विषाणो आहत्य पञ्च सहस्र प्रकरणानि समक्षमायातानि सन्ति इत्थं मुम्बय्यां षष्ट्युत्तर सप्त शत मितानि नूतन प्रकरणानि समक्षम् आयातानि सन्ति

विगत चत्र्विंशति होरा भ्यन्तर अष्टाविंशति सहस्रोत्तर षड् लक्षाधिकानि सूच्यौषधानि सन्ति वितरितानि सम्प्रति पञ्च चत्वारिंशत् सहस्रोत्तर सप्तदश लक्षाधिक एक कोटि मितृष्चि जनध्यि सूच्योषध वितरणमस्ति जातम्